प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्य असमस्य बिहप्रिया क्षेत्रे अपि च सिपाझर क्षेत्रे एका जनसभा सम्बोधिता आई एस् एस् एफ ति विश्व चषक लक्ष्यवेध स्पर्धामालिकायां चिंकी यादव ऐश्वर्य प्रताप सिंह तोमर च स्वर्ण पदकं विजितवन्तौ

भवन्त अपि अस्माभि सह सुरक्षाया उपाय त्रयस्य सङ्कल्प स्वीक्र्वन्त् मुख आवरक सन्धारयन्त सामाजिक दूरतां पालयन्तु पाणि पादं च यथा समयं प्रक्षालयन्त् औषधम् अपि सम वधानता अपि

अनेन पत्रेण तया मुख्यसचिवा प्रशासका च निर्दिष्टा यत् होली शब ए बारात बिह ईस्टर ईद उल फितर उयादीनां उत्सवानां अवसरे जनानां सम्मर्दः न भवेत् ति निश्चयेयु सचिवेन आरती आहजया उक्तयत् वर्धमानानि कोरोणा प्रकरणानि दृष्ट्वा अस्माभि अनवधानता न करणीया दिल्ली प्रशासनेन च अस्मिन्नेब संदर्भे सर्वेपिआपत्प्रबन्धन आरक्ष्यादिविभागा निर्दिष्टा सम्मर्द निवारणाय कोरोणाया प्रशमनाय च

नवदिल्ल्यां केन्द्रीय मन्त्रिमण्डलस्य उपवेशनानन्तरं केन्द्रीय सूचना प्रसारण मन्त्री प्रकाश जावडेकर बार्ताहरान् सम्बोधयता ित्र समसूचितवान् पञ्जीकरणस्य आरम्भ अप्रैल मासस्य प्रधम दिनांकात् भविष्यति स प्रार्थितवान् यत् योग्यजना शीघ्रमेव पंजीकरणं कुर्वन्तु

महाराष्ट्रे ह्य पञ्चपञ्चाशदथिक अष्ट शतोत्तर एकत्रिशत् सहस्र नूतनप्रकरणानि पञ्जीकृतानि राज्य स्वास्थ्य विभागानुसारेण राज्ये पञ्चनबति जना कालकवलिता सूच्यन्ते तत्रैव अप्टनवत्यधिक पञ्चदश सहम्र रोगिण अस्मात् रोगात् विमुक्ता वर्तमाने नवनवत्यधिक द्विशतोत्तर सप्तचत्वारिशत् सहम्रोत्तर द्वि लक्ष यावत् सक्रिय प्रकरणानि वर्तन्ते राज्यस्य प्रत्यवाप्तिमिति एकं द्वे दशमलवोत्तर अष्टाशीति प्रतिशतं अस्ति

प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्य असमस्य बिहप्रिया क्षेत्रे अपि च सिपाझर क्षेत्रे एका जनसभा सम्बोधिता

तत्रैव तृणमूल कांग्रेस नेता पश्चिमबंगालस्य मुख्यमंत्री च ममता बनर्जी अपि बांकुराया बिश्नुपुरे एको जनसभा सम्बोधितवती

पुरूषाणां पंचाशत् मीटर रा फिल श्री पोजिशंस् व्यिस्यां प्रतिस्पर्धायां ऐश्वर्य प्रताप सिंहेन स्वर्णपदकं विजितं अध च महिलाबगे अस्या प्रतिस्पर्धाया चिकी यादव त्यनया स्वर्ण पदक विजितम्